चिरात् प्रतीक्षितं जगतो महत्तमं कोविड् मसूरणाऽभियानं गतदिवसे प्रधानमन्त्रिणा समारब्धम् प्रधानमन्त्रिणा देशे उद्यमितायाः प्रोत्साहनार्थं सहस्र कोटि रूप्यकाणां स्टार्ट अप इण्डिया बीजकोष योजनायाः समुद्घोषणा विहिता ब्रिस्वन् क्रिकेट् निकष स्पर्धायाः तृतीय दिवसे भारतेन स्वीय प्रथम पाल्याम् इदानी यावत् क्रीडक त्रयस्य हानि प्रस्सर सप्त विंशत्यधिकाः शतं धावनांकाः अर्जिताः

भवन्तोऽपि अस्माभि सह सुरक्षाया उपाय त्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिक दुरतां परिपालयन्तु पाणिपाद च यथासमयं प्रक्षालयन्त् यावन्नौषधम् तावन्न शैथिल्यम् इदानीं वार्ता विस्तरणि प्रधानमन्त्री क्विड़िया प्रधानमन्त्री श्रीनरेन्द्र मोदी देशस्य विभिन्न क्षेत्रै सह ग़जरातस्य केवड़िया क्षेत्र योजयन्ति अष्टौ रेल यानानि अद्य दृश्य श्रव्य प्रणाल्या ध्वजं प्रदर्श्य प्रस्थापयिष्यति अवसरेऽस्मिन् श्रीमोदिना गुजरातस्य नैकाः अन्याः अपि रेल परियोजनाः समुद्घाटविष्यन्ते उद्घाटन क्षणे ग्जरातप्रदेशस्य मुख्यमन्त्री विजय रूपाणी केन्द्रीय रेलमन्त्री पीयूष गोयलश्च सम्पस्थितौ भविष्यतः कोविड् मसूरणम् चिरात् प्रतीक्षितं जगतो महत्तमं कोविड़ मसुरणाऽभियानं गतदिवसे प्रधानमन्त्रिणा समारब्धमं दुश्य श्रव्य प्रणालिकया अभियानस्य शुभारम्भं विदधानः श्रीमोदी न्यगादीत यद भारतस्य कोविड़ मसुरणाऽभियानं मानवीय सिद्धान्तेष् आधारितं विद्यते तनोदीरितं यन्मसूरणमिदं तेषां जनानां शरीरेष् प्रथमतया विधास्वते ये सम्प्रति समधिकतया संक्रमण संकटं संम्खीकर्वाणाः सन्ति विगतेभ्यो नैकमासेभ्यः कोविड मसूरणस्य निर्माणे संलग्नान् वैज्ञानिकान् मुक्तकण्ठं प्रशंसन् प्रधानमन्त्री प्रावोचत् यद् भारतीयं कोविड मसूरण वैदेशिकेभ्यः कोविड मसूरणेभ्यः अल्पार्यतर विद्यते परम् अस्य ग्णवत्ता न खल् कृतश्चिदपि न्यूनतराऽस्ति अपरतः स्वास्थ्य मन्त्रालय स्थः अपर सचिवः डा मनोहर अग्नानी वार्ताहरान् व्याज्ञापयत् यद् राष्ट्र व्यापिनो मसूरणाऽभियानस्य ह्यः प्रथमे दिवसे देशस्य एक नवति सहस्राधिकाः लक्षनं जनाः मसूरिताः तेन पृष्टीकृतं यन्मसूरणाऽनन्तरं न खल् केनापि जनेन कीदृग्विधमपि अस्वास्थ्यम अनुभूतम कोविड् प्रतिशतता अत्रान्तरे देशे कोविड ऊन विंशति महामारी तः स्वस्थीभृतानां जनानां प्रतिशतता प्रवर्ध्य सम्प्रति षण्णवति दशमलव पञ्च षट् परिमिता संवृत्ताऽस्ति विगते अहोरात्रे पादोन सप्तदश सहस्रं जनाः कोविड महारोगाद निमुक्ताः पञ्चदश सहस्र प्रायाणि नूतन संक्रमण प्रकरणानि च प्रत्यक्षमायातानि सपाद द्विशतं जनाश्च रोगेणैतेन मृत्यूम्पगताः संसूचिताः प्रम स्टार्टअपबीजकोषयोजना प्रधानमन्त्रिणा देशे उद्यमितायाः प्रोत्साहनार्थं सहस्र कोटि रूप्यकाणां स्टार्ट अप इण्डिया बीजकोष योजनायाः समुद्वोषणा विहिता

ततः पूर्वम् आतिथेयेन आस्ट्रेलिया दलेन स्वीय प्रथमपाल्यां संकलय्य ऊनसप्तत्यधिकाः त्रिशतं धावनांकाः अर्जिताः आसन्